विधानसभा निर्वाचनानां द्वितीय चरणाय नामांकन पत्र प्रप्रण प्रक्रिया प्रारब्धं झारखण्डे आतंकिनौ मारितौ सुरक्षाबलै उत्तरीकश्मीरस्य बांदीपोरा जनपदे महाराष्ट्रम् महाराष्ट्रे राजनीतिक गतिरोध सम्प्रवर्तित राज्ये प्रशासन विरचनस्य स्थिति साम्प्रतं यावत् स्पष्टा नास्ति मुम्बयां राष्ट्रवादी कांप्रेसदलस्य कोर समित्या उपवेशनान्तरं दलेन स्वीय स्थिति स्पष्टा न कृता मम्बव्यामद्य राष्ट्रवादी कांप्रेस दलस्य प्रमुखस्य शरद पवारस्य अध्यक्षतायां सम्मेलनानन्तरं दलप्रवक्त्रा नवाब मलिकेन वार्ताहरैस्सह सम्भाषणे प्रोक्तं यत् तदीय दलेन राज्ये वर्तमान स्थिति विषये निज विचार न घोषित वार्ताहर सम्मेलने मल्लिकार्ज़न खडगे प्रोक्त यत् विचार विमर्शार्थं महाराष्ट्रस्य कांप्रेस नेतार दिल्लीम् आहता अपरत्र शिवसेनाया नेतृभि अद्य प्रशासन विरचन संकल्पं प्रस्तौत् राज्यपालेन भगत सिंह कोशियारिणा मेलनस्य संभावना व्याहृता एकस्मिन् घटनाक्रमे राष्ट्रिय जनतान्त्रिक संयुते प्रशासने शिवसेनाया मन्त्रिणा अरविन्द सावन्तेन केन्द्रीय मन्त्रिमण्डात् त्यागपत्रं प्रदत्तम् तेन स्वीय त्यागपत्रमिदं प्रधानमन्त्रिणे समर्पितम् तेन निर्णयोऽयं महाराष्ट्र प्रशासन संरचन प्रकरणे भाजपा शिवसेनयोर्मध्ये च गतिरोध कारणात् स्वीकृत झारखण्डम् झारखण्डे विधानसभा निर्वाचनानां द्वितीय चरणस्य अधिसूचना प्रकाशिता एतेन सहैव विधानसभाया विंशति आसनानां कृते नामाकंन पत्र प्रप्रण प्रक्रिया प्रारब्धा चरणेऽस्मिन् अष्टादश दिनांकं यावत् प्रपत्राणि प्रप्रयिष्यन्ति अन्वीक्षणं च नवदश दिनांके भवितम् नवम्बर एकविंशे नाम प्रत्यावर्तनानि भविष्यन्ति मतदानानि च दिसम्बर सप्तमे दिवसे भविष्यन्ति उपराष्ट्रपति उपराष्ट्रपतिना एम् वेंकैया नायड़ना संसद राज्य विधायिकानां च मध्ये महिलाभ्य पर्याप्त आरक्षणं प्रदाय तासां राजनीतिक सशक्तिकरणस्य आवश्यकता प्रबला व्याहृता उपराष्ट्रपति अद्य नवदिल्ल्यां जवाहरलाल नेहरू विश्वविद्यालयस्य तृतीय दीक्षांत समारोहे ब्रवीति स्म

राष्ट्रपति राष्ट्रपतिना रामनाथकोविन्देन परिष्कृत भद्रतम शिक्षां राष्ट्रस्य पुनर्निर्माणे महत्वाधायिनी विज्ञापिता तेन प्रात पश्चिम बंगालस्य शान्ति निकेतने विश्व भारती विश्वविद्यालस्य वार्षिकं दीक्षान्त समारोहं सम्बोधितम् राष्ट्रपतिना अवसेरऽस्मिन् शिक्षाया विषये ग्रूदेवस्य रविन्द्रनाथ ठाकुरस्य महात्मा गान्धिनश्च विचारा पुन व्याहृता

ग्जरात मुख्यमन्त्रिणा विजय रूपानी ग्जरातराज्यस्य संसाधन विकास मण्डलस्य अध्यक्ष रुपेण स्वीकृतिरेषा प्रदत्ता प्रधानमन्त्री प्रधानमन्त्री नरेन्द्रमोदी मासेऽस्मिन् चतुर्विंशे दिवसे एकादश वादने प्रातौ आकाशवाणीत मन की बात कार्यक्रमे देशौ विदेशै जनैस्सह स्वीयोद्रारा प्रकटिष्यति इदं कार्यक्रमस्य ऊनषष्टि संस्करणं विद्यते जम्मू कश्मीरम् केन्द्रशासित प्रदेशे जम्मू कश्मीर उत्तरी कश्मीर बांदीपोरा जनपदे अज्ञातातंकिनौ मारितौ